दिल्ली निर्वाचन दिल्ली विधानसभनिर्वाचनानां कृते अद्य अधिसूचना प्रकाशनेन सह नामांकन प्रक्रिया प्रारब्धा प्रत्याशिन अस्य मासस्य एकविंशति दिनांकं यावत नामांकन पूरयित्ं शक्ष्यन्ति दवाविंशे दिने नामांकनपत्राणां निरीक्षणं तदन् चत्र्विशेदिने नामांकन प्रत्यवर्तनस्य अन्तिमो दिवसो अविष्यति सप्तति आसनान्वितायै विधानसभायै फरवरीमासस्य अष्टमे दिने मतदानं भविष्यति मतगणना च एकादशे दिनांके निर्धारितास्ति भारत बांग्लोदश भारत बांग्लादेशाभ्याम अदय आकाशवाणी बांग्लादेश बेतार इत्यनयो मिथ कार्यक्रमाणाम आदान प्रदान सम्बद्धं ज्ञापनपत्रं हस्ताक्षरितम भारतीय राष्ट्रिय चलचित्र निगमस्य बांग्लोदश चलचित्रविकास निगमस्य च मिथ अपि सन्धिपत्रज्ञापनं हस्ताक्षरितम सुचनाप्रसारणमन्त्रिण प्रकाशजावडेकरस्य बांग्लादेशस्य सूचना प्रसारणमन्त्रिण मोहम्मद एच महमूदस्य च उपस्थितौ एतानि पत्राणि हस्ताक्षरितानि श्रीजावड़ेकर प्रावोचत यत देशद्वयस्य कार्यक्रमाणां आदान प्रदानेन नूतन आयामा निर्मास्यन्ते दिल्ली अगस्ता दिल्ली उच्चन्यायालयेन अग्रस्ता वैस्टलैण्ड उदग्रविमानवञ्चनायां धनशोधन प्रकरणे मध्यप्रदेशस्य मुख्यमन्त्रिण कमलनाथस्य भातृव्य रत्नपुर्या प्रतिभूति निराकरण विषयिणी प्रवर्तन निदेशालयस्य याचिका निरस्तीकृता

मुम्बय्यां प्रथमास्पर्धायां भारतेन ऑस्ट्रेलियादलाय षड्पंचाशतःछत्तर द्विशत धावनांकानां विजयलक्ष्यं प्रदत्तमस्ति